देशे कोविड नवदश संक्रमणात स्वास्थ्य लाभ मिति समेध्य पंचनवति दशमलव एक दवे प्रतिशन्मिता संवृत्ता जम्मुकश्मीरे जनपद विकासपरिषन्निर्वाचनाय सप्तचरणात्मकं मतदानं संपन्नमं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

प्रधानमन्त्रिणा नरेन्द्रमोदिना विजयदिवस्य पंचाशत्तमे वर्षग्रन्थि उपलक्ष्ये राष्ट्रिय समर समारक इति स्थानके वीरभरेभ्य श्रद्धास्मनानि समर्पितानि अत्रावसरे रक्षामन्त्रिणा राजनाथ सिंहेन अपि स्वर्णिम विजय वर्षम् इत्याख्यस्य स्मृतिचिन्हं एकम् अनावृतम्

अस्मिन्नेव दिने बांग्लादेशस्य स्थापना जाता

तत्रैव वीरभटानां बलिदानं प्रत्येकमपि भारतीयं प्रेरणाथं प्रदर्शयति सहैव अस्माकं राष्ट्रं वीरभटान् ससम्मानं सर्वदैव स्मरिष्यति बांग्लादश विजय विगत शताब्दस्य एकसप्ततितमे वर्षे अद्यतने एव दिने पाकिस्तानीय बंगबंध् शेख म्जीब्र रहमान इत्याख्यस्य नेतृत्वे एकं सार्वभौमं राष्ट्रत्वेन विश्वमान चित्रे बांग्लादेशराष्ट्रं समुद्भुतमासीत् बांग्लादेशे एतददेव दिनं बिजोय दिबोस इति नाम्ना स्वोत्सवं आमान्यते अत्रावसरे बांग्लादेशे अपि मुक्ति संग्रामस्य वीरभटानां स्मृतौ राष्ट्रपतिना अब्दल हामिदेन अपि च प्रधानमन्त्रिणा शेख हसीना वर्यया अपि राजधान्यां ढाकायां सावर राष्ट्रिय स्मारके श्रदधासुमनानि समर्पितानि कोविड अपडठ देशे कोरोना महामार्या स्वस्थतामानं पंचनवति दशमलव दवौ एकं प्रतिशन्मितम् अंकितम् विगतचत्विंशति होरास् त्रयस्त्रिंशतोप्यधिका जना आरोग्यम् अवाप्य गृहं प्रत्यागता आहत्य आरोग्यमाप्तवतां जनानां संख्या षड् पंचाशत सहस्रधिक चत्र्नवतिलक्षमिता संजाता

सम्प्रति देशे सक्रिय कोरोनाप्रकरणां संख्या द्वात्रिंशत् उत्तर त्रिलक्षमिता अस्ति जम्मू जम्मुकश्मीरे जनपद विकासपरिषन्निर्वाचनाय सप्तचरणात्मकं मतदानं संपन्नम अस्मिन् चरणे एकत्रिंशत् जनपद विकास परिषत्क्षेत्रेभ्य मतदानम् आयोजितम् तेष् त्रयोदश कश्मीरमंडलस्य अष्टादश च जम्मुमंडलस्य विदयन्ते बिटम भारतयात्रारतो ब्रिटेनस्य विदेशमंत्री डॉनिमिकराब प्रधानमंत्रिणा नरेन्द्रमोदिना साकं संभाषणं अकरोत् अत्रावसरे श्रीमोदिना ब्रिटेनस्य प्रधानमंत्रिणा बोरिस जॉनसनेन सह द्रभाषिक संभाषणोल्लेखं विधाय प्रतिपादितं यत् कोविड संक्रमणस्य अनन्तरं विश्वे भारत ब्रिटेनयो सहयोग विषये बलं प्रदत्तम् प्रधानमंत्रिणा नरेन्द्रमोदिना द्विपक्षीय संबंधोन्नयनाय व्यापार निवेश रक्षा शिक्षा ऊर्जा जलवाय्परिवर्तन स्वास्थ्य सम्बद्धक्षेत्रेष् सहयोग संवर्धनं प्रतिपादितम् ब्रिटेनस्य विदेशमंत्रिणा श्रीरॉबेन तत्रत्य प्रधानमंत्रिण बोरिस जॉनसनस्य एकं पत्रं मोदिने प्रदत्तम यस्मिन अग्रिम वर्ष ब्रिटेनस्य अध्यक्षतायाम आयोजयिष्यमाने सप्तदेशानां समुहस्य उपवेशने भागग्रहणाय श्रीमोदी आमंत्रितो विदयते निमंत्रणं स्वीकृत्य प्रधानमंत्रिणा तस्मै धन्यवाद प्रदत्त एससी कषका सर्वोच्चन्यायालयेन उक्तं यत् असौ संघर्षरतानां कृषकाणां प्रकरणे शान्तिपूर्णरित्या तेषां समस्या समाधानाय विशिष्टसमिते रचना विषये चिन्तयति प्रधानन्यायाधीश एसएबोबड़े न्यायमूर्ति एएस बोपन्ना अपि च वीरामासुब्रमण्यम इत्येतेषां खण्डपीठेन उक्तं यत् संघटमानायाम् समितौ भारतीय कषक संघस्य भारत प्रशासनस्य अन्ये च कृषिसंघटनानां प्रतिनिधय भविष्यन्ति तत्रैव न्यायलयेन कृषि विधेयकं विरुध्ये राष्ट्रिय राजधानी क्षेत्रे प्रदर्शनरतानां क़षकाणां अपसारणसम्बधे दवे याचिके श्र्ते

दलनायको विराटकोहली प्रथम निकष स्पर्धानन्तरं पारिवारिक कारणै भारतं प्रत्यागमिष्यति तदीयान्पस्थितौ अंजिक्य रहाणे दलस्य नेतृत्वं निभालयिष्यति

अपि च प्रशासनं कृषकाणां समस्यानां समाधानं विदधत्

इति वार्ता